वियतनाम प्रधानमन्त्रिणा मेलनं विहितम्

प्रधानमन्त्री प्रधानमिन्त्रणा नरेन्द्रमोदिना अद्य अशेष देश सम्मुखीकरण वैश्विक समाह्वानि प्रमुखतया प्रतिपादितानि प्रैंशिया शिखरोपवेशने बैंकॉक नगरे श्रीमोदिना सर्वासां समस्यानां समाधानं कार्यम् सम्भूय आचरणस्यावश्यकतापि प्रबला व्याहता श्रीमोदी वियतनाम प्रधानमन्त्रिणा अपि मिलितवान् श्रीमोदी आरसीईपी सम्मेलनेऽपि सहभागं करिष्यति देवेन्द्र फडणवीस महाराष्ट्रस्य मुख्यमन्त्रिणा देवेन्द्र फडणवीसेन अद्य नवदिल्ल्यां गृहमन्त्रिणा अमितशाहेन मेलनं विहितम् श्री फडणवीसेन महाराष्ट्रे अऋत्कालिक वृष्टे प्रभावित कृषकाणां सहायतायै केन्द्रत सहायता अभ्याचिता विपक्षोपवेशनम् वरिष्ठा विपक्षि दलानां नेतार नवदिल्ल्यां अर्थव्यवस्था क्षेत्रीय अर्थव्यवस्थाया सहभागिता विषये मिलितवन्त सम्भाषणेऽस्मिन् ग़्लाम नबी आजाद अहमदपटेल रणदीप स़्जेवाला अपि सम्मिलितवन्त

रक्षामन्त्री रक्षामन्त्रिणा राजनाथसिंहेनोक्तं यत् युद्धानां स्वरूप परिवर्तयति सूचना कालेऽस्मिन् समस्या सम्मुखी कर्त् आपातकालिका सज्जा अपर्याप्ता अद्य नवदिल्ल्यां डिफेंस एक्सपो विंशत्युत्तर द्विसहस्रतमे राजदृत सम्मेलने अभिभाषयन् असौ प्रोक्तवान् यत् प्रविधि विकासेन वर्तमानिक युद्ध प्रणाली परिवर्तिता तेन भणितं यत् रक्षोद्योग सैनिका कर्मचारिणश्च विषम परिस्थित्यां संरक्षा सुरक्षार्थं प्रशिक्षयति जम्मू कश्मीर जम्मू कश्मीरस्य केन्द्रशासितभूतानन्तरं वारप्रथमं भारतीय सेना तत्र भट प्रवेश जनसभाया आयोजनं करोति दश दिवसीय सभाया अस्या आयोजनं सांबा जनपदे विहितम्

एतदथं श्रीनगरे प्रशासनेन पञ्चषष्टि विशेष कियोस्क इति आन्तर्जालिक केन्द्राणि स्थापितानि सम विषम दिल्ल्यां यातायातस्य सम विषम योजना अद्य प्रारब्ध योजनान्तर्गत दिनांकान्सारेण सम विषम संख्याकानि कार्यानानि प्रचलिष्यन्ति मुख्यमन्त्रिणा अरविन्द केजरीवालेन जना अध्यर्थिता यत् ते जनहिते सम विषम नियमा अन्पालयेयू नियमोल्लंघने चतुस्सहस्र रूप्यकाणां श्ल्कं भविष्यति वार्ताहरेण सूचितं यत् दिल्ली यातायातस्य आरक्षि राजस्व विभागस्य च षड शततोऽधिक दलं योजनायां नियोजिता उच्चतम न्यायालय उच्चतम न्यायालयेन प्राधिकरण दिल्ली राष्ट्रिय राजधानी क्षेत्रे च प्रसुत पर्यावरण प्रदृषण कृज्झिटिकाया विषये तस्य विहिता प्रयासानां विफलीकरणे तीव्राघात प्रदर्शित जावड़ेकर केन्द्रीय पर्यावरण ऋत् परिवर्तन मन्त्रिणा प्रकाश जावड़ेकरेणोक्तं यत् एनडीए प्रशासनं उद्योगानां स्वतन्त्रतायै सज्जं वर्तते